स्वास्थ्य मन्त्रालयेन निर्दिष्ट यत् राज्यै संघ शासित प्रदेशैश्च सार्वजनिक उपक्रमाणा चिकित्सालयेष् कोविड रोगीणां उपचारार्थं शय्याया व्यवस्था करणीया रूस देशीय कोविड सूच्यौषधं स्पुत्निक वी इत्यस्य प्राप्ति अस्मिन् मासे एव भविष्यति

एतदर्थं निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्तु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

सममेव सर्वकारेण चिकित्साया आधारभृत संरचनायां पीरष्कारार्थमपि कार्याणि क्रियन्ते तेन उक्तं यत् देशे आक्सीजन इति प्राणवायो वेंटिलेटर इत्यस्य अन्येषाम् आवश्यकवस्तूनां च अल्पता नास्ति स्वास्थ्य मन्त्री प्राोक्तवान् यत् सर्वकारेण रेमडेसिविर इत्यस्य औषधस्य उत्पादने वृद्धि कर्तु निर्देशा प्रदत्ता सममेव राज्येभ्यो प्रवर्तन प्राधिकरणेभ्यो औषध नियन्त्रकेभ्यो च रेमडेसिविर इति औषधस्य निश्चितमूल्यात् अधिकमूल्यप्रहणार्थं कठोरतमां कार्यवाहीं कर्त् निर्देशा निर्देष्टा अद्य डॉ हर्षवर्धन एम्स इति अखिल भारतीय आयुर्विज्ञान संस्थानस्य अपि निरीक्षणं कृतवान् सः आगामिषु दिनेष् विभिन्नानां स्वास्थ्य केन्द्राणाम् अपि निरीक्षणं करिष्यति सः प्रोक्तवान् यत् इदानीं भारतम् कोविड महामारीं विरूध्य संघर्षे गतवर्षापक्षेया भद्रतरायां स्थितौ अस्ति स्वास्थ्य मन्त्री प्रोक्तवान् यत् कोविड संक्रमणस्य प्रकरणेष् एतावता महती वृद्धि जनै कोविड दिशानिर्देशानं उचित पालनं न करणात् एव अभवत् स सबलं प्रत्यपादयत् यत् जनै संक्रमणं रोद्धूं उपयुक्ता उपाया अवश्यमेव अन्पालनीया

सार्वजनिक उपक्रम स्वास्थ्य मनत्रालयेन निर्दिष्टं यत् राज्यै संघ शासित प्रदेशैश्च सार्वजनिक उपक्रमाणां चिकित्सालयेष् कोविड रोगीणां उपचारार्थं शय्याया व्यवस्था करणीया सममेव एतादृशानां चिकित्सालयानां विवरणं जनेभ्यो अपि अश्वयमेव दीयताम केन्द्रीय स्वास्थ्य सचिवेन मन्त्रालयान् प्रति लिखिते पत्रे प्रतिपादितं यत् देशे कोविड संक्रमणे वृद्धि निध्याय गतवर्षवत् पुन कार्यकरणस्य आवश्यकता अस्ति रेल सेवा रेलसेवा मण्डस्य अध्यक्ष सुनीत शर्मा प्रोक्तवान् यत् भारतीय रेलसेवा पूर्ववत् एव प्रचलिष्यति अद्य दिल्ल्यां वार्ताहैर सह एकस्यां संक्षिप्त वार्तायां तेन प्रतिपादितं यत् रेलसेवायाश्व पिधानस्य न्यूनीकरणस्य वा कापि योजना नास्ति सममेव तेन प्रतिपादितं यत् विभिन्नान् उत्सवान् अभिलक्ष्य गतिदिनेष् चत्वारिशदधिक एकशाताधिकानि रेलयानानि सब्चालितानि अनेन यात्रायां सामाजिक दरताया अनुपालनस्य सम्भावना अस्ति

आईपीएल् इंडियन् प्रीमियर् त्लीग् विंशति प्रति विंशति क्षेप चक्रीय क्रिकेट् स्पर्धा मालिकायां गतरात्रौ मुम्बय्याः वानखेड़े क्रीडांगणे आयोजितायाम् एकस्यां रोमाञ्चकारिण्यां स्पर्धायां राजस्थान रॉयल्स् दलेन दिल्ली कैपिटल्स् दलं त्रिभिः क्रीडकैः पराजितम् आईपीएल श्रृंखलायाम् अद्य पंजाब किंग्स चेन्नई सुपर किंग्स दलयोर्मध्ये स्पर्धा भविष्यति